देशे साम्प्रतं यावत् द्विपञ्चाशल्लक्षोतर सप्तदशकोटिमितानि सूच्यौषधानि जनेभ्यः वितारितानि सन्ति केन्द्रप्रशासनेन कोविड महामार्या अनन्तरं म्यूकोरमाइकोसिस रुग्णतां निध्याय एम्फोटेरिसन बी इति औषधस्य उपलब्धता संवर्द्धिता अपि च तमिलनाडौ कोविड महामार्या अंतर्गतं सेवावधौ हतिंगतेभ्यः चिकित्सकेभ्यः पञ्चविंशतिलक्षमितात्मिका राशिः सम्द्घोषिताः अद्य अन्ताराष्ट्रिय उपचारिका दिवसो वर्तते

बिहार प्रशासन बिहारसर्वकारेण अष्टादश आय्वर्गीयात् चत्श्चत्वारिंशत् वयोवर्गीयेभ्यः जनेभ्यः निःश्ल्करूपेण सूच्यौषधप्रदानाय सहस्नैककोटिरुप्यकानां राशिः समुद्घोषिता मुख्यमंत्रिण नीतीशक्मारस्य आध्यक्षे समायोजिते उपवेशने निर्णयोऽयं गृहीतः

एवमेव राज्येस्मिन् साम्प्रतं यावत् चत्रशीतिलक्षाधिककोविडसूच्यौषधानि जनेभ्यः वितरितानि सन्ति

सूचनाप्रसारणमंत्रिणा प्रकाशजावडेकरेणोपि उपचारिकाभ्यः अन्तःहृदयेन आभारः अभिव्यक्तः